प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य ट्विटर इति सामाजिक सञ्चार पटलं विविध क्षेत्रेष् लब्धप्रतिष्ठाभ्य सप्त महिलाभ्य सञ्चालनाय प्रदत्तम् केरलप्रदेश पत्तनमथिट्टा जनपदे अदय कोविड नवदश इति कोरोना सड़क्रमणस्य पञ्च प्रभावितजना दरीदृष्टा मुम्बय्या एकेन न्यायालयेन धनशोधनप्रकरणे यसबैंकस्य संस्थापक राणा कप्र बृधवासरं यावत् प्रवर्तननिदेशालयस्य निगडने प्रेषित महिलानां विंशति प्रतिविंशति क्षेचक्रीय विश्वचषक क्रिकेट शड़खला ऑस्ट्रेलिया दलेन विजिता

इमे राष्ट्रियप्रस्कारा प्रतिवर्ष पश्चवर्ति महिलानां सशक्तिकरणाय अन्करणीय कार्यकर्तृभ्य जनेभ्य समवायेभ्य संस्थानेभ्यश्च प्रदीयन्ते

विश्वे महिला प्रुषयोः समानाधिकाराणां समान कार्य कौशलानाम् अथ च सर्वेष् क्षेत्रेष् महिलानां विवर्धमान योगदानस्य समुल्लेख अन्ताराष्ट्रिय महिला दिवसायोजनस्य मुख्यमुददेश्यं विदयते अस्मिन वर्ष अहमस्मि वंशावहा समानता महिलानाम् अधिकारान् जानामि इति महिला दिवसस्य विषय वर्तते अत्रावसरे राष्ट्रपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च सर्वाभ्य महिलाभ्य श्भकामना प्रदता प्रधानमन्त्री टिवटर प्रधानमन्त्रिणा नरेन्द्रमोदिना अदय ट्रिवटर इति सामाजिक सञ्चार पटलं विविध क्षेत्रेष् लब्धप्रतिष्ठाभ्य सप्त महिलाभ्य सञ्चालनाय प्रदतम् श्रीमोदिना व्यलेखि यत् एताषां महिलानां उपलब्धय ज्ञास्यन्त् ताभ्य शिक्षाग्रहणं च कुर्वन्त्वति एताभि महिलाभि निज जीवनस्य अनुभवा जनानां समक्षम् उपस्थापिता प्रधानमन्त्री कोरोना प्रधानमन्त्री नरेन्द्रमोदी कोरोना विषाणुना समृत्पन्नां स्थितिं समैक्षत

अत्रोपवेशने स्वास्थ्यमन्त्री डॉ हर्षवर्धन विदेशमन्त्री डॉ एस जयशइकरश्च समृपस्थितौ आस्ताम मन्त्रणावधौ श्रीमोदिना कोविड नवदश विषाणूं नियन्त् विभिन्न विभागै सम्पकल्पिता प्रयासा प्रशंसिता

समेडपि प्रभावितजना विशेष चिकित्सादलस्य निरीक्षणे प्रेषिता सन्ति राज्यस्य स्वास्थ्यमन्त्री केकेशैलजा प्रोक्तवती यत् एतेष् त्रय इटली देशात् प्रत्यावर्तिताः सन्ति अन्यौ च एतेषां सम्बन्धिनौ स्तः तयोक्तं यत् राज्ये सङ्क्रमणनिरसनाय पर्याप्त प्रबन्धा उपकल्पिता सन्ति अत्रान्तरे दिल्ल्या मुख्यमन्त्री अरविन्द केजरीवाल प्रावोचत् यत् प्रशासनं कोरोना वायरस इति विषाणो सङ्क्रमणं निराकर्त् सन्नदधं वर्तते तेन जना अध्यार्थिता यत् तेषां विषये सूचनां प्रयच्छन्त् यै विगत सप्ताहदवये विदेशयात्रा विहितास्ति यस बैंकस्य संस्थापक मुम्बष्या एकेन न्यायालयेन धनशोधनप्रकरणे यसबैंकस्य संस्थापक राणा कप्र बृधवासरं यावत् प्रवर्तननिदेशालयस्य निगडने प्रेषित अस्माकं वार्ताहरेण सूचितं यत् मुम्बय्यां दिनद्वयं यावत् परिपृच्छानन्तरम् असौ निगडित

अत्रावसरे अद्यारभ्य पोषणपक्ष प्रारब्धः